केन्द्रप्रशासनेन प्रतिपादितं यत् पञ्चदश देशानां राजदूता अद्य जम्मूकश्मीर यात्रा रता सन्ति भारतीय स्थल सैन्य प्रमुख जनरल मनोज मुकुन्द नरवणे अद्य प्रात सियाचीने सैन्यस्थानक शिविर निरीक्षितवान्

प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी प्रख्यातै अर्थशास्त्रिभि उद्योगिजनैश्च सार्थं मन्त्रितवान् आर्थिकरूपेण भारतं पञ्च अर्बुद डॉलर युतं लक्ष्यं विनिर्मातुं पदक्षेपा समृत्थापयित्म् प्रधानमन्त्रिणा इमे समाहता

जम्मूकश्मीर यात्रा केन्द्रप्रशासनेन प्रतिपादितं यत् पञ्चदश देशानां राजदता अद्य जम्मकश्मीर यात्रा रता सन्ति राजदतानां सविशेषाप्रहानगणं प्रशासनेन यात्रेयं समायोजिता विदेशमन्त्रालयीय प्रवक्ता रवीश कुमार न्यगादीद् यत् जम्मूकश्मीरे प्न प्रवर्तितं सामान्य जन जीवन शैलि सम्बद्ध विस्तृत सूचना संकलनं उद्दिश्य यात्रेयं समनुष्ठितास्ति श्रीनगरमुपेत्य राजदृता राज्यस्य समाजस्थै प्रब्द्ध वर्गे राजनेतभिश्च सार्धं संवादमाचरितवन्त जम्मूकश्मीरं सम्मर्शदा जम्मूकश्मीरे उपराज्यपालस्य गिरिश चन्द्र मूर्म वर्यस्य त्रिभ्योऽपि सम्मर्शदेभ्य विभागीय उत्तरदयित्वम् समेऽपि इमे स्वीय विभागेष् मन्त्रालय स्तरीय अधिकारा प्रदत्ता फारूक खान के के शर्मा राजीव रॉय भटनागर नामाख्या त्रय सम्मर्शदा सन्ति कल्याणकारि योजना तत्रैव जम्मूकश्मीरे सकलानामपि विभागीय वित्तकोषाणां न्यूनातिन्यूनं प्रतिशतं दशमिता राशि जनजातीयानां प्रोत्साहनमुद्दिश्य आवण्टिता अत्रान्तरे राज्यपालेन जी सी मूर्मवर्येण मासत्रये एव कल्याणकारि कार्यक्रमाणाम् समायोजन पूर्वकं जनजातीय समृदायानां सौविध्यं सुनिश्चेत् अधिकारिणो विनिर्दिष्टा एतदतिरिब्य रेल सेवामाध्यमेन कश्मीरम् अशेषदेशत संयोजयिष्यते कार्यमिदं अग्रिमवर्षस् दिसम्बरमासं यावत् सम्मपत्स्यते इति ब्र्ते कोन्कन रेल विभागीयोध्यक्ष संजय ग्रप्ता सैन्यप्रम्ख भारतीय स्थल सैन्य प्रमुख जनरल मनोज मुकृन्द नरवणे अद्य प्रात सियाचीने सैन्यस्थानक शिविरं निरीक्षितवान् सियाचीन यात्रा वधौ सैन्यप्रमुखेण अतितरां शीतप्रभाविते क्षेत्रे प्रतिकूल परिस्थितिष् देशसेवायै रतानां भटाना चर्चितम् देशसेवाकाले समन्भूतानां सैनिकानां समस्या समाधानमपि अमुना सुनिधितम् देशस्य अष्टाविंशतितम स्थलसेनाप्रमुखत्वेन पदभार ग्रहणानन्तरं तस्य प्रथमेयं यात्रा विद्यते

विभिन्नेषु राष्ट्रेषु प्रवसद्भि भारतीय समुदायै भारतस्य उन्नतये विहितानि योगदानानि संस्मत्हैं प्रतिवर्ष दिवसोऽयं परिपाल्यते एकोनविंशति शताब्द्या पञ्चदशे वर्षे एतस्मिन्नेव दिवसे महात्मागान्धी दक्षिणाफ्रीकादेशत स्वदेशं प्रत्यागत आसीत् त्रि अधिंक द्वि सहस्र तम वर्षत एव दिवसोऽयं विदेशमन्त्रालय आमानयति

विगते दिनद्रये जम्मूकश्मीर हिमाचलप्रदेशेच संजातात् हिमपातात् वृष्टिकारणाच्च शीतलहरी अतोऽपि समेधिता